राष्ट्रपतिना रामनाथकोविन्देन प्रोक्तं यत् भारतस्य उच्च शिक्षाप्रणाल्या विस्तार देशस्य ग्रामीणक्षेत्रेष् समाजस्य च उपेक्षितवर्गान्तं यावत् भवेत केन्द्रीयमन्त्रिमण्डलेन अदय प्रधानमंत्रि स्वास्थ्य स्रक्षानिधि इति योजनाधारितो धनराशि असमाप्त्यात्मको घोषित काश्मीरपंडितानां बृहत्तमस्य हेरथााख्यस्य उत्सवस्यावसरे श्रीमतामोदिना सर्वेभ्य काश्मीर पण्डितेभ्य वर्धापनानि वितरितानि

तीरथसिंहरावत तीरथसिंहरावत उत्तराखण्डस्य नूतन म्ख्यमंत्री अस्ति प्रदेशस्य निवर्तमान म्ख्यमन्त्रिणा त्रिवेन्द्रसिंह रावतेन हय राज्यपालवर्यायै त्यागपत्रं दत्तम् अदय च विधायकानां सम्पवेशने श्रीमतृतीरथसिंहरावतस्य नाम्न घोषणा भाजपादलपक्षत घोषिता श्रीरावतेन वार्ताहरा निवेदिता यत् प्राक्तनप्रशासन द्वारा नीतनिर्णयानाम् लोकहितैषणा अग्रेनयनमेव अस्मत्प्रशासनस्य प्राथमिकीति अद्यैव प्रशासनस्यास्य शपथग्रहणमपि अभवत्

दलस्य सांसदैश्च कोविडमहामारीत रक्षायै देशस्य आर्थिकोन्नत्यै च प्रधानमंत्री प्रशंसित

राष्ट्रपति तना राष्ट्रपतिना रामनाथकोविन्देन प्रोक्तं यत् भारतस्य उच्च शिक्षाप्रणाल्या विस्तार देशस्य ग्रामीणक्षेत्रेष् समाजस्य च उपेक्षितवर्गान्तं यावत् भवेत् अद्य वेल्लोरनगरे तिरुवल्लुवरविश्वविदयालयस्य षोडशतमं वार्षिकदीक्षांतसमारोहं संबोधयता राष्ट्रपतिना निगदितं यत् भारतं विश्वस्य तृतीयं सर्वातिशायित्वेन बृहद् शिक्षाप्रणालीय्तं राष्ट्रमस्ति

गडकरी केन्द्रीय सुक्ष्म लघ मध्यमोदयोगमन्त्री नितिनगडकरी अदय सुक्ष्मलघुमध्यमोदयागानां कृते दवयो प्राविधिक केन्द्रयो त्रयाणां च बाह्यकेन्द्राणाम् दृश्यश्रव्यप्रणालिकया उद्घाटनं व्यदधात्

एतानि केन्द्राणि प्रतिवर्ष षोडशसहस्रं छात्राणां प्रशिक्षणं विधास्यन्ति श्रीमान् गडकरी सममेव सप्त उद्यमत्वरितसौविध्य य्क्तानि बाहनानि द्र्गमक्षेत्रेष् सूक्ष्मोद्यागान सौविध्यप्राप्त्यर्थं सम्दघाटितवान्

कांग्रेसडीएमकेएनसीपी प्रभृतिविपक्षिदलै कृषि अधिनियमं विरुध्य प्रदर्शनं विहितम् लोकसभायां गतमासे एव एष अधिनियम पारित आसीत् वित्तीयसाहाय्यम् केन्द्रप्रशासनेन चत्र्दशराज्येभ्य वित्तीयहानिपूर्तये साहाय्यधनं चत्र्णवति उत्तर एकशताधिक षड्सहस्ररूप्यात्मकं प्रदत्तम् अनेन सममेव योग्यराज्येभ्य चत्वारिंशदधिक त्रिशतोत्तर चत्ः सप्ततिसहस्र कोटिमितं धनं केन्द्रपशासनेन अस्मिन् वित्तीयवर्ष हानिपूर्त्यर्थ प्रदत्तमस्ति वित्तीयमन्त्रालयान्सारि अन्मोदितं धनं सम्पूर्णरूपेण अध्ना राज्येभ्य प्रदत्तम् अस्ति पंचदशतमवित्तायोगानुसारि इमानि राज्यानि सन्ति आन्ध्र प्रदेश आसाम हिमाचलप्रदेश केरल मणिप्र मेघालय मिजोरम नागालैण्ड पंजाब सिक्किम तमिलनाड् त्रिप्र उत्तराखण्ड पश्चिमबंगाला च

लोकसभायां भोजनकालाद् अनन्तरं वारं वारं विरामप्रस्सरं अद्यतनं कार्यजातं निरस्तीकृतम् इतः प्राक् कांग्रेस वामपन्थी डीएमके एनसीपी शिवसेना प्रभृतीनां दलानां सदस्यै सर्वकारं विरूध्य घोषा उद्घोषिता लोकसभाध्यक्ष ओमबिरला वारंवारं विरोधं क्र्वतः सदस्यान् स्वस्थानं ग्रहीत् प्रार्थयत सदनस्य कार्यजातं सम्पूर्णदिवसाय निरस्तीकृतम् राज्यसभायाम् अपि समाना एव स्थिति ृष्टा कांग्रेससदस्यै विरोधघोषप्रस्सरं विरोध स्थिति जनिता राजयसभाया कार्यजातम अपि सहभागमध्यस्थता अधिनियमस्य पारितादनन्तर दिवसाय निरस्तीकृतम्

स्वास्थ्य मन्त्रालयेन निष्पादितं यत् अस्यां संख्यायां त्रिंशत्सहस्राधिक एक सप्ततिलक्षाधिका स्वास्थ्यकर्मिण प्रथमं सूच्योषधं प्राप्तवन्त तथा च प्रायश ऊनचत्वारिंशत्लक्षं स्वास्थ्यकर्मिण द्वितीयं सूच्यौषधं प्राप्तवन्तः सन्ति तत्रैव समग्र देशे स्वस्थतामिति षण्णवति दशमलव नव षण्मिता पंजीकृता

सः अग्रे न्यगादीत् यत् विधानसभानिर्वाचनाय अपि नेतार भिन्नतया उपवेशनं क्वन्ति न तु कांग्रेसदलस्य प्रदेशसमित्यान्सारि